प्रधानमन्त्री प्रधानमन्त्री श्रीनरेन्द्र मोदी अद्यापराह्ने थाइलैण्डदेशीय त्रिदिवसव्यापिन्यै यात्रायै बैंकोकनगरं सम्प्राप्त तत्र असौ षोडशतमे आसियान भारतशिखरोपवेशने चत्र्दशतमे पूर्वैशिया शिखरोपवेशने तृतीये क्षेत्रीयविस्तृतार्थिक सहभागिता शिखरोपवेशने च भागं भजिष्यति यात्राप्राक् अनेनोक्तं यत् भारतम् आसियान देशै साकं द्रढ़सम्पर्क संस्थापनाय उत्सुको वर्तते अग्रे तेनोक्त यत् प्वैंशियाशिखरसम्मेलनं भारत प्रशांत क्षेत्राय अस्माकं द्रष्टिकोणं प्रस्तोत्म् अवसरान् प्रददाति तेन इदमपि उक्तं यत् क्षेत्रीय विस्तृतार्थिक सहभागिता सम्मेलने नेतार अस्मिन् प्रसंगे भवितव्यानां सन्धीनां प्रगतिसमीक्षां विधास्यन्ति

रक्षामन्त्री उज्बेकिस्तानस्थे ताशकन्दे समायोजिते शंघाई सहयोग संघ ि शिखरोपवेशने सम्भाषते स्म अमुनोक्त यत् समाजे देशोन्नतये चापि आतंकीयद्ष्प्रभाव साक्षात् द्रग्गोचरीभवति अत आतंकवाद विरूद्धय कठोराचरण शंघाई सहयोग संघटिन सम युक्तानां देशानां महत्वाधायिनं कर्म विद्यते

तत्र हि आतंकवादिन परिपाल्यन्ते

अष्ट दिशोत्तर द्वि सहम्र तम वर्षाय आतंकवाद विषये विभागेन प्रख्यापितस्य वृत्तान्सारि इस्लामाबादे परिपालितानाम् लश्कर ए तैयबा जैश ए मोहम्मदादिनाम् आतंकिग्ल्मानां पोषणे धनप्रदाने प्रशिक्षणे चापि प्रतिबन्ध प्रकल्पने पाकिस्तानं सर्वतोभावेन वैफल्यं प्राप्तम् छठपर्व बिहारप्रदेशे छठपर्वविशेष धार्मिक हर्षोल्लासेन आमान्यते इदानी श्रद्धालव नदीष् तडागेष् सरोवरेष् च अस्तं याति सूर्य प्रति अर्घ्यदानं करिष्यन्ति अस्माकं वार्ताहर सूचयति यत् कर्णप्रिय मुधरगीत संगीतै सूर्यष्ठीपर्व भक्तिमयं संदृश्यते चतुर्दिवसीयोऽयं महोत्सव श्व प्रात सूर्यार्घ्य प्रदानेन अवसानं प्राप्स्यति

आईएफएफआई प्रस्कार प्रथित चलच्चित्राभिनेता रजनीकान्त अस्मिन् मासे आयोज्यमाने अन्ताराष्ट्रिय भारतीय चलच्चित्र समारोहे आइकन इति विशिष्ट प्रस्कारेण समलंकरिष्यते अद्य नवदेहल्यां घोषणेयं प्रख्यापयन् सूचनाप्रसारणमन्त्री श्री प्रकाशजावडेकर प्रावोचत् यत् पुरस्कारोऽयं विगत कतिपय दशकेभ्य भारतीय चलच्चित्र जगति विहितोल्लेखनीय योगदानाय प्रदीयते